मानव संसाधन विकास मन्त्री रमेश पोखरियालो निश्शंक दिल्लीस्थे जवाहर लाल नेहरू विश्वविद्यालये सद्यो द्रापन्नां हिंसा घटनां विनिन्दितवान्

भारतम् पाकिस्तानम् पाकिस्तानस्य पेशावर प्रान्ते एकस्य अल्पसंख्यक सिख जनस्य सद्यो द्रापादितं सुनियोजित हननं भारतेन कठोरतया विनिन्दितम् विदेश मन्त्रालय पाकिस्तानम् अभियाचितवात् यद् एतस्मिन् क्रूर कर्मणि संलिप्ता जना तेन उदाहरणीय दण्डेन दण्डनीया

तेन तत्रत्या स्थिति द्र्भाग्यपूर्णा चिन्ताजनिका च वर्णिता श्रीनिश्शंक तत्र शान्ति व्यवस्था सन्धारणाय छात्रान समाहवयत् दिल्ल्या उपराज्यपाल अनिल बैजल प्रावोचत् यत् परिसरे शिक्षकान् छात्रान् च विरुध्य हिंसा नितरां निन्दनीयाऽस्ति रक्षामंत्री रक्षामन्त्री राजनाथसिंह प्रावोचत् यत् लखनऊनगरे प्रथमवारं पञ्चदिवसीया रक्षा प्रदर्शनी समायोज्यते गतदिने म्ख्यमन्त्रिणा योगि आदित्यनाथेन सह आयोजनस्य सज्जाया निरीक्षणानन्तरं रक्षामन्त्रिणा निगदितं यद् उत्तरप्रदेशाय अयम् ऐतिहासिको निर्णय विद्यते अस्मिन् आयोजने पञ्चविंशते राष्ट्राणां रक्षामन्त्रिणां सैन्याध्यक्षाणां च सहभागिताया सम्भावनाऽस्ति

राज्य प्रशासनेन विषयेऽस्मिन् सैद्धान्तिकी स्वीकृति पूर्वमेव प्रदत्ता आसीत् शीतलहरी उत्तर भारतस्य अधिक तरेष् भू भागेष् शीतलहरी साम्प्रतमपि यथावद् अनुवर्तते भारतीय ऋत् विज्ञान विभागेन आगामिष् त्रिष् दिवसेष् हिमाचल प्रदेशे जम्मू कश्मीरे च प्रबल हिमपातस्य चण्ड वृष्टेश्च पूर्वानुमानं प्रकाशितम् आगामिनि दिवसत्रये राष्ट्रिय राजधान्यां दिल्ल्यां मन्दवृष्टि संभाविताऽस्ति

क्रिकेट् भारत श्रीलंकयोर्मध्ये हयो गुवाहाट्यां समायोज्या प्रथमा विंशति प्रतिविंशति क्षेपचक्रीया क्रिकेट्स्पर्धा वृष्टि करणात् निरस्ता तत पूर्व ह्य क्रीडारम्भे भारतेन पणकं विजित्य प्रथमं क्षेत्र रक्षणाय निर्णीतम्